अपरं च कैश्चिद् अपरैः दिनैः इतोधिकेभ्यः देशेभ्यः सूच्यौषधसम्प्रेषणस्य कार्य विधास्यते तेनोक्त यत भारतेन यथासमय विश्वस्य नैकेषा देशानां स्वास्थ्य सम्बद्ध आवश्यकताः पूरिताः तदर्थ भारतं प्रति सहयोगिदेशानां सम्मानयुता दृष्टिः वर्तते

धनराशिरयं प्रधानमंत्री ग्रामीण आवास योजनाया अंतर्गतं प्रख्यापयिष्यते

अनेन साकमेव सबसधता परिमिति समेध्य प्रतिशतं दशमलवोत्तर षट षडधिक षण्णवति मिता संजातास्ति विगत चत्र्विशति होरास् कोविड संक्रमणस्य चत्ष्षष्ट्यधिक दश सहस्रमिताः रोगिणः पुष्टिङ्गताः सन्ति

कृषक वार्ता केन्द्रीय सर्वकारेण सह कृषकप्रतिनिधीनां स्निश्चितं दशमं सम्भाषणं अद्य भविष्यति

बॉर्डर गावस्कर चषकम पूर्ववत भारतस्यैव पार्श्वे स्थास्यति